दृश्यश्रव्यमाध्यमेन सम्मेलनं सम्बोधयन् श्रीमोदी न्यगादीत् यत् जलवायुपरिवर्तनमपि जनस्रक्षायाः अर्थव्यवस्थायाः च संरक्षणेन समं महत्वपूर्ण विद्यते प्रधानमन्त्रिणा इदमपि उक्तं यत् भारतं न्य्नकौकिलीय उत्सर्जनस्य क्षेत्रे अपि कार्य करोति

प्रधानमन्त्री विंध्याचल प्रधानमन्त्रिणा नरेन्द्रमोदिना हयः उत्तरप्रदेशस्य विन्ध्याचल क्षेत्रान्तर्गतं मिर्जाप्र सोनप्र जनपदयोः ग्रामीण पेयजल आप्र्ति परियोजनायाः दृश्य श्रव्य परान्तर्जालीय माध्यमेन आधारशिला न्यस्ता श्रीमोदी अस्मिन्नवसरे ग्रामीण जल स्वच्छता समितेः सदस्यैः साकं वार्ताः अपि सम्पादितनान् प्रधानमन्त्रिणा प्रोक्तं यत् उत्तरप्रदेशे आभिः योजनाभिः हर घर नल जल परियोजनायां प्रगतिः भविता सममेव प्रधानमन्त्रिणा विन्ध्याचल क्षेत्रे त्रयोविंशतिः जलपेयपरियोजनानां आधारशिला संस्थापिता

साम्प्रतं देशे पञ्चचत्वारिंशत् सहस्रधिक नूतन प्रकरणैः साकं देशे सप्ताधिक अष्टशतोतर पञ्चनवति सहस्रोतर नवतिलक्षप्रकरणानि वर्तन्ते येष् सपादपञ्चाशीति लक्षाधिकाः जनाः स्वस्थतांगताः

सेन्ट्रल टीम्स केन्द्रप्रशासनं हिमाचल प्रदेश पञ्जाब उत्तर प्रदेश चेति राज्येष् कोविड प्रबन्धनाय उच्चस्तरीय दलानि सम्प्रेषयत् ध्यानास्पदं तथ्यमिदं यत् एतेष् राज्येष् कोरोना इति वैश्विक संक्रमणस्य प्रकरणानि तीव्रगत्या उपचीयन्ते इति व्रिसदस्यात्मकं केन्द्रीय दलं संक्रमणग्रस्त क्षेत्राणां निरीक्षणं विधास्यति इति